सायंसार्धचतुर्वादनंयावतुअसम राज्येदवाषष्टिदशमलवत्रि षट्एवंपश्चिमबंगालप्रदेशेसप्ततिदशमलवएक सप्तप्रतिशन्मितंमतदानमअंकितम्

प्रधानमंत्री बांग्लादेशे जेशोरेश्वरी काली मन्दिरस्य समीपस्य एकस्य साम्दायिकभवनस्य निर्माणाय अन्दानस्य अपि घोषणा कृतवान् देशे अद्यावधि एकाशीत्य्त्तर पंचकोटितोप्याधिकजनेभ्य कोरोनामहामार्या स्च्यौषधानि प्रदत्तानि अमेरिकाया राष्ट्रपतिनावैश्विक जलवाय् सम्मेलनेभागग्रहणायश्रीमोदीनिमन्त्रित

ध्यातव्यमस्ति यत् अस्मिन् चरणे असमराज्यस्य सप्तचत्वारिंशत् क्षेत्रेष् अपि च पश्चिमबंगालराज्यस्य त्रिंशत् आसनेभ्य मतदानानि प्रचलन्ति असमराज्ये षडवादनं यावत अपि च पश्चिमबंगाल राज्ये सार्ध षडवादनं यावत मतदानं प्रचलति अवसरे अस्मिन् प्रधानमन्त्री ग़हमन्त्री सूचना प्रसारणमन्त्री च उभयो राज्ययो जनान् विप्लसंख्यायां मतदानं कर्त् उक्तवन्त मतदानम् सायं सार्धचतुर्वादनं यावत असम राज्ये दवाषष्टि दशमलव त्रि षट एवं पश्चिमबंगालप्रदेशे सप्तति दशमलव एक सप्त प्रतिशन्मितं मतदानम् अंकितम् असम राज्यस्य दवादशजनपदेष् सप्तचत्वारिंशत निर्वाचनक्षेत्रेष् त्रयोविंशति महिला समेत्य चत्षष्टि उत्तर द्विशतप्रत्याशिन स्वीयभाग्यं परीक्षन्तः सन्ति प्रथमे अस्मिन् चरणे एकाशीति लक्ष मतदातार स्वीयमतदानाधिकारम् अर्हन्ति राज्ये अस्मिन् एकादशसहस्राधिकानि मतदानकेन्द्राणि विनिर्मितानि सन्ति तट्रैव पश्चिम बंगाल राज्ये पंचजनपदानां त्रिंशत्विधानसभा आसनेभ्यः मतदानार्थ दशसहस्राधिकानि मतदानकेन्द्राणि निर्मितानि सन्ति प्रधानमनत्रीबांग्लादेश अदय प्रधानमंत्री नरेन्द्र मोदी बांगलादेशस्थे ओराकांडी इति क्षेत्र मटवाइत्यमं समृदायं सम्बोधितवान् प्रधानमंत्री अवादीत् यत् भारतं बांगलादेशं दवौ अपि देशौ विकासकार्यै प्रगति माध्यमेन विश्वे स्थिरता स्नेहः शान्तिश्च इच्छन्ति सः अवादीत् यत् दवाभ्याम् अपि देशाभ्याम् कोरोना महामार्या विषमे परिस्थितौ स्वसामर्थ्य प्रदर्शितम् अतएव अद्य राष्ट्रदवयम् महामारीं विरूदध्य दृढ़तया संघर्षरतम् अस्ति श्रीमता मोदिना प्रोक्तं यत् भारते निर्मितस्यसृच्यौषधस्य प्राप्ति सर्वेभ्यो बांग्लादेशीयनागरिकेभ्यो भवत् इति भारतस्य कर्तव्यभावना अस्ति प्रधानमंत्री बांग्लादेश जेशोरेश्वरी काली मन्दिरस्य समीपस्य एकस्य साम्दायिकभवनस्य निर्माणाय अन्दानस्य अपि घोषणा कृतवान् अस्मिन् सामुदायिक केन्द्रे समुद्री झंझावातेन प्रभावितानां सर्वधर्माणां जनानां कृते आश्रयस्य सौविध्यं भविष्यति आस्मिन् अवसरे प्रधानमन्त्रिणा श्रीमता मोदिना देव्यै काल्यै स्वर्णरजताभ्यां निर्मितम् एकं म्क्टम् अपि समर्पितम् प्रधानमंत्री मोदी बांग्लादेशस्य त्गीपाडास्थस्य बंगबंध् म्जिब्र्रहमान इत्यस्य मकबरा प्रति गत्वा प्ष्पचक्रम् अपि समर्पितवान् अत्र श्रीमन्तः मोदिनः स्वागतार्थ बांग्लादेशस्य प्रधानमन्त्री शेख हसीना अपि उपस्थिता आसीत्

स्वास्थ्यमन्त्रालयेन सूचितं यत् विगते अहोरात्रे षड्विंशतिलक्षाधिक जनेभ्य सृच्यौषधं प्रदत्तम एतदन्तराले त्रिंशत सहस्राधिका जना स्वास्थ्यलाभं प्राप्तवन्तः सम्प्रति कोरोना स्वास्थतामानं चत्र्णवति दशमलव अष्ट चत्ः प्रतिशतं अंकितम् अस्ति आहत्य द्वादश लक्षाधिकैककोटिजना साम्प्रतं यावत् स्वस्था अभ्वस्था देशे कतिपयेष् राज्येष् कोरोनासंक्रमण प्रकरणानि वर्धमानानि सन्ति सम्प्रति देशे सक्रियप्रकरणानां संख्या द्वापंचाशदुत्तर चतुर्लक्षाधिका अस्ति

ट्विटर इत्यस्य माध्यमेन तेन प्रतिपादितं यत् सः गृहे पृथक् वासस्य अपि च चिकित्सकै निर्दिष्टानां सर्वेषां अपेक्षितानां दिग् निर्देशानां परिपालनं करोति अद्य वरिष्ठ अभिनेता परेश रावल अपि कोरोना विषाणो संक्रमितः अभूत् सः उक्तवान् यत् तै सर्वै अवश्यमेव कोरोनाया परीक्षणं क्र्यात् ये तस्य सम्पर्के आगता

दिल्ली राज्यस्य स्वास्थमन्त्रिणा सत्येन्द्र जैनेन अद्य नवदिल्यां वार्ताहरान् सम्बोधयता प्रतिपादितं यत् कोरोनाप्रकरणस्य समाधानं पूर्णपिधानं नैव वर्तते अमूना एतदपि उक्तं यत् प्रथमं पूर्णपिधानं विशेषज्ञानां परामर्शान्ग्णं कृतमासीत् परन्त् अस्माभि संक्रमणं पूर्णत निरोदध्यं न शक्तम् अत्रावसरे श्रीमताजैनेन दिल्यां कोरोनासंक्रमण विषयेपि सूचितं यत् अत्रापि संक्रमणस्य प्रकरणानि अभिवर्धमानानि सन्ति परन्त् अस्माकं प्रशासनं एतत्सम्बद्धं सर्वाणि सुरक्षोपायानि विदधाति

इदनीमपि सः दैनिक उपचाराधीन अस्ति अदय एकस्मिन् टवीट सन्देशे राष्ट्रपतिना स्वशभेच्छजनान् नागरिकान् प्रति धन्यवाद ज्ञापित अवधेयास्पादम् अस्ति यत् गतदिने राष्ट्रपति वक्षस्थले पीडा कारणात् उपचाराय चिकित्सालयं गतवान् आसीत्

राष्ट्रपतिः जो बाडडेन जलवायप्रकरणसम्बदधं आर्थिकलाभोपरि ध्यान केन्द्रीकरणाय मोदी सहित ं विश्वस्य चत्वारिशत् नेतृणाम् एकं सम्मेलनं आयोजनाय निर्णयम् अकरोत् दविदिवसीय सम्मेलनमिदं आभासीय माध्यमेन अप्रैल मासस्य दवाविंशति त्रयोविशति दिनांकयो समायोजयिष्यते एतस्य सजीवप्रसारणं विभिन्न संचारमाध्यमै भविष्यति अत्रावसरे अमेरिकादेशीयेन राष्ट्रपतिना शिखर सम्मेलनार्थ आमन्त्रित विशिष्टनेतृष् चीनदेशीय राष्ट्रपति शी जिनपिंग रूसस्य राष्ट्रपति व्लादिमीर प्तिन जापानदेशस्य प्रधानमन्त्री योशिहिदे सुगा ब्राजील देशस्य राष्ट्रपति जायर बोल्सोनारो कनाडादेशस्य प्रधानमन्त्री जस्टिन ड्रूडो इजरायलदेशस्य प्रधानमंत्री बंजामिन नेतन्याह साउदी अरबस्य शाह सलमान अल सउद अपि च ब्रिटेन देशस्य प्रधानमन्त्री बोरिस जानसन सम्मिलिता सन्ति मन की बात प्रधानमंत्री नरेन्द्र मोदी श्व पूर्वाहने एकवादने मन की बातइत्यस्मिन् कार्यक्रमे स्वविचारान् प्रकटयिष्यति इदं प्रसारणम् आकाशवाण्या मासिक कार्यक्रमस्य पंचसप्तति संस्करणम् भविष्यति कार्यक्रमस्य प्रसारणम् आकाशवाण्या दूरदर्शनस्य च सर्वै माध्यमै करिष्यते

कार्यक्रमस्य हिन्दीप्रसारणस्य अनन्तरं क्षेत्रीयभाषास् अपि प्रसारणं करिष्यते

इति वार्ता